प्रधानमंत्री नरेन्द्रमोदी अद्य प्रातः एकादश वादने आकाशवाण्याः मन की बात इति कार्यक्रमे स्वविचारान् प्रस्तोष्यति राष्ट्रपतिः रामनाथकोविंदः अद्य अफ्रीकायदेशत्रयस्य यात्रायां प्रतिष्ठते श्रीकोविंद बेनिन गाम्बिया गिनी देशानां सप्तदिवसीय यात्रां विधास्यति प्रधानमंत्री प्रधानमंत्री नरेन्द्रमोदी अवोचत् यत् सुरक्षाबलानां आधुनिकीकरणं प्रशासनस्य सवोच्चप्राथमिकता वर्तते तेनोक्त यत् रक्षोत्पादनस्य स्वदेशीकरणं क्रियते प्रधानमंत्री गतदिने नवदिल्ल्यां इन्दिरागांधी क्रीडांगणे करगिल विजयदिवस कार्यक्रमं सम्बोधयति स्म श्रीमोदिना प्रोक्तं यत् मेक इन इण्डिया कार्यक्रमं प्रोत्साहयित्ं निजी क्षेत्रस्य सहभागिता वर्धितु प्रयासाः विधीयन्ते प्रशासनेन विगत पञ्चवर्षेषु सैनिकाना तेषा परिवाराणा च कल्याणाय महत्वपूर्ण निर्णयाः स्वीकृताः मन की बात प्रधानमंत्री नरेन्द्रमोदी अद्य प्रातः एकादश वादने आकाशवाण्याः मन की बात इति कार्यक्रमे स्वविचारान् प्रस्तोष्यति आकाशवाण्याः दरदर्शनस्य च सर्वाभिः प्रसारणवाहिनिभिः कार्यक्रमोऽयं प्रसारयिष्यते हिन्दी भाषायां प्रसारणानन्तर क्षेत्रीय भाषासु कार्यक्रमस्य प्रसारण भविष्यति राष्ट्रपति राष्ट्रपतिः रामनाथकोविंदः अद्य अफ्रीकायदेशत्रयस्य यात्रायां प्रतिष्ठते श्रीकोविंद बेनिन गाम्बिया गिनी देशानां सप्तदिवसीय यात्रां विधास्यति अस्मांक वार्ताहरेण सूचितं यत् एतेषां राष्ट्राणां कस्यापि भारतीय राष्ट्रपतेः प्रथमा यात्रा भविष्यति यासीन भ ग्जरातस्य एकेन न्यायालयेन द्रयोत्तर द्रिसहस्रतमे वर्षे गांधीनगरस्य अक्षरधाममन्दिर दुरापादिताक्रमणस्य कथित मुख्य षडयन्त्रकर्ता यासीनभटः गतदिने सप्तदिवसेभ्यः आरक्षिनिग्रहणे प्रेषितः प्रधानसत्र न्यायाधीशेन अपराधशाखायाः चतुर्दशादिवसीय निगड़न याचिका निराकृता

आशीषकुमारेण पव्चसप्ननिकिलो ग्रामभारवर्गे कोरियायाः किम जिनजाए इत्येनं पराजित्य स्वर्ण पदक विजितम्